विगते सप्ताहावधौ एकस्मिन्नेव दिनेप्राय चत्र्लक्ष संख्याकानि प्रकरणानि प्ष्टिं गतानि आसन् देश अध्नावधि एकसप्ततिलक्षाधिकपञ्चदशकोटिसूच्यौषधानि प्रदत्तानि अद्य समायोक्ष्यमाणा आईपीएल क्रिकेट्स्पर्धा निरस्ता कोविड सन्देश प्रियाः श्रोतारः कोविइनवदशसङ्क्रमणे वृद्धिः प्नर्जायते एतदर्थ निवेद्यते यत् असवाधनतां मा व्यवहरन्त् सममेव पञ्चचत्वारिंशत् वर्षतो वयोधिकैः सर्वैः जनैः सूच्योषधं स्वीकरणीयम् भवन्तः भवत्यश्च सुरक्षायाः उपायत्रयस्य सङ्कल्पं स्वीकृत्य सुरक्षिताः भवन्तु मुखनासिकावरकं सन्धारयन्तु दैहिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

तेन भारते यूरोपीयसंघदेशेष् च कोविडस्य वर्तमानस्थितौ विचाराः प्रकटिताः कोविडमहामार्याः उपरि नियन्त्रणाय भारतस्य प्रयासेष् अपि चर्चा कृता श्रीमान् मोदी भारतस्य सहातायै यूरोपीयसङ्घस्य तस्य देशानां च प्रशंसाम् अकरोत् उभौ नेतारौ अस्मिन् सहमतिं प्रकटितवन्तौ यत् आगामि अष्टमे दिनाड्के भाविसम्मेलनम् उभयोः सम्बन्धानां दृढीकरणाय महत्वपूर्णः अवसरः भविष्यति

एतेष् नवसप्तत्यधिकपञ्चदशकोटिमितानां सूच्यौषधानाम् उपयोगः विहितः अस्ति स्वास्थ्य परिवार कल्याण मंत्रालयेन निगदितं यत् अध्नापि राज्यानां केन्द्रशासितप्रदेशानां च पार्श्वे पञ्चसप्ततिलक्षं सूच्योषधानि समुपलब्धानि सन्ति मन्त्रालयः समाश्वसयत् यत् आगामित्रिभिः दिनैः एतेभ्यः षष्टिलक्षस्चयौषधानि सम्पलब्धानि कारयिष्यन्ते स्वास्थ्यमन्त्रालयः कोरोणासङ्क्रमणात् स्रक्षायै सूच्यौषधीकरणम् एव महत्वपूर्णम् अस्ति इति उक्तवान् देशे सूच्यौषधीकरणस्य तृतीयं चरणं प्रारब्धम् अस्ति

अत्रांतरे केवलं आवश्यक वस्तूनां हट्टकानि उद्घटिता स्थास्यन्ति नात्यावश्यक वस्तूनां हट्टकानि अस्य मासस्य पंचदश दिनांकं यावत् पिनद्धा भविष्यन्ति प्रयोगशालासुचिकित्साप्रतिष्ठानेष् च न कथमपि रोधादेश प्रवर्तयिष्यते आधिकारिक प्रवक्ता समसूचयत् यत् विभिन्न यानै समागच्छन्त यात्रिण कोरोना कोरोना संक्रमिता सन्ति चेत् राज्यं नैव प्रवेष्टं अर्हिष्यन्ति कार्यालयेष् बैंकेष् च पंचाशत् प्रतिशतं कर्मिण एव उपस्थास्यन्ते चत्ष्चक्रिकायां जनद्वयमेव अन्मतम् अस्ति रोगिवाहियानान् आदेशात् विम्क्तानि सन्ति विवाह समारोहेष् अंतिम संस्कारे वा दशाधिकजना न सम्मिलिता भविष्यन्ति अत्रांतरे कृषक संघटनानिधर्मग्रवः साग्रहं विनिवेदितवन्तः यत् ते सभानाम् आयोजनं न क्र्वन्त् सकलेष् राजनीतिक समारोहेष् समस्तेपि राज्ये पूर्ण प्रतिबंध भविष्यति उक्तानाम् आदेशानाम् उल्लंघकर्तृण विरोधे आपदा प्रबंधन अधिनियमस्य महामारि रोग अधिनियमस्य च अन्तर्गतं प्राथमिकी कारयिष्यते सूच्यौषधम् देशे अध्नावधि एकसप्ततिलक्षाधिकपञ्चदशकोटिसूच्यौषधानि प्रदतानि स्वास्थ्य परिवार कल्याण मंत्रालयः ज्ञापितवान् यत् ह्यः दशसहस्राधिकद्वादशलक्षाधिकानि सूच्यौषधानि प्रदतानि ओडिशा ओडिशायां कोरोनाविषाणोः समेधमानं सड़क्रमणं ध्यात्वा प्रशासनेन चतुर्दश दिवसात्मकः प्रदेशव्यापी गमनागमरोधस्य निर्णयः कृत रोधादेश ब्धवासरात् प्रारभ्य मे मासस्य ऊनविंश दिनांकपर्यन्तं प्रवर्तयिष्यते प्रदेशे प्रतिदिवसात्मिका सड़क्रान्तसड़ख्या दशसहस्रादपि अधिका जायते गमनागमरोधावधौ खाद्यवस्तूनां क्रयणाय आपणानि प्रातः षड्वादनात् दवादशवादन पर्यन्तं उदघाटयिष्यन्ते

देशे संक्रमणस्य दवितीये प्रकोपमध्ये अद्य समागता किंचित्शान्तिदा सूचना समधिगता विगते सप्ताहावधौ एकस्मिन्नेव दिनेप्राय चतुर्लक्ष संख्याकानि प्रकरणानि पृष्टिं गतानि आसन्

तत्रैव अनुक्रमं दवितीये दिने अद्य त्रिलक्षतोधिका रोगिण स्वस्था अभूवन् अपरत्र नैकेष् राज्येष् महामार्या सक्रिय प्रकरणेष् वृद्धि जायते देशे साम्प्रतं विषाणो स्वस्थताप्रतिशतता एकाशीति दशमलव सप्त षट् परिमिता अस्ति स्वास्थ्यपरिवारकल्याणविभागानुसारं अद्यावधि भूयोपि दविषष्टिलक्षाधिकैक कोटि संक्रमण ग्रस्ता जना आरोग्यं प्राप्तवन्त साम्प्रतं भारते त्रयोदश सहस्राधिक चतुस्त्रिंशत् लक्षाधिका रोगिण उपचर्यमाणा सन्ति गते अहोरात्रे सप्तदशाधिक चतुःशतोतर त्रिसहस्रं पीडिता प्राणै विमुक्ता अद्यावधि मृतकानां संख्या आहत्य प्राय अष्टादश सहस्रोत्तर द्विलक्षमिता संजाता अत्रांतरे भारतीय आयुर्विज्ञान अनुसंधान परिषद् प्रत्यपादयत् यत् विगतास् चत्र्विंशति होरास् पंचदश लक्षतोपि अधिकानां जनानां परीक्षणं संजातम् अपरत्र गते अहोरात्रे पंचदश लक्षतोप्यधिकानां कोरोना प्रारूप परीक्षणं विहितम् प्रशिक्षणं षोडश लक्षाधिक नवविंशति कोटितोप्यधिकानां कोरोना प्रारूप परीक्षणं सम्पन्नम्

अहमदाबादे कोलकाता नाइट राइडर्स रॉयल चैंलेजर्स बैंगल्रु दलयो मध्ये समायोक्ष्यमाणा प्रतियोगिता स्थगिता कोलकाता नाइट राइडर्स दलस्य क्रीडकदवयं संक्रमण ग्रस्तं सूच्यते इदं हि कारणं स्पर्धाया स्थगनं निर्णीतम् स्पर्धाया नूतनतिथि पश्चात् घोषयिष्यते तावत् ध्येयं यत् गतदिने अहमदाबादे समायोजितायां स्पर्धायां दिल्ली कैपिटल्स दलेन पंजाब किंग्सदलं सप्त क्रीडकानां हानिप्रस्सरं पराजितम् अनेन जयेन सममेव दिल्ली कैपिटल्सदलं दवादश मानांक प्राप्य अंकतालिकायां शीर्षत्वं भजमानं अस्ति तत्रैव पंजाब किंग्सवन्दं षष्ठे स्थाने वर्तते